वित्तमन्त्रिणा निर्मला सीतारमणप्त नवदिल्ल्यां राज्य वित्तमन्त्रिभि सार्धम् आय व्यय पत्रक पूर्व चर्चा विहिता जनानाम् आकांक्षा प्रपूरयितुं राज्य क्विशासितप्रदर्शाये सहयोगाग्रहोऽपि विहित योग अद्य पञ्चम अन्ताराष्ट्रिय योग दिवसम्पलक्ष्य राजधान्यां नवदिल्ल्यां बहव कार्यक्रमा समायोज्यन्त राष्ट्रपतिना रामनाथकोविन्दर्भ मेवदिल्ल्यां राष्ट्रपति भवन स्मिमायोजित स्क्रिस्मन् कार्यक्रम प्रिक्त यत् योग मानवतां प्रति भारतदृष्पिय उपहारो वर्तत स अथ च योग स्वस्थ जीवन मन शरीरस्य च मध्य ित्रेतलनस्य संचित निधि वर्तत उपराष्ट्रपतिना एम वेंकैया नायडुना रक्तदुगे ब्रह्मकुमारी संघ ि पक्षत समायोजित किार्यक्रम स्रिणितं यत् योग शारीरिक स्फूर्ति चत्तियुतार्थम् एक उपाय मन्यत स्रिधानमन्त्रिणा नरछिमोदिनोक्तं यत् प्रशासनः पञ्चवर्षेष् योगं स्वास्थ्यया साकं सम्पृक्तम् यद्व योग स्वास्थ्य सद्व या सशक्त आधारो वर्ततः झारखण्डस्य राजधान्यां राज्य्याम् अद्य योग दिवसस्य मुख्य आयोजनं सम्बोधयता प्रधानमन्त्रिणा ग्रामीण जनजातीय क्षद्य अपि योगस्य महत्वं सम्प्रध्याणाय तस्य आवश्यकतायां बलं प्रदत्तम्

राष्ट्रिय राजधान्यां दिल्ल्यां उत्तरप्रदर्या ग्जराता असमात्रिमिलनाडौ दर्यस्थ सर्वेष् राज्यप्र च विभिन्न योग कार्यक्रमा आयोजिता मुख्य कार्यक्रम राजपथ आयोजित अत्र बहव मन्त्रिण उपराज्यपाल राज्यानां मुख्यमन्त्रिण राजनाथसिंह प्रकाशजावडक्ति समाविष्ठ ी सन्ति ज ्रीी नड्डा वर्य दीनदलाय उपाध्याय स्थलञिगसत्रं सम्बोधितवान्

समारोहर्विमन् भूरिश जना सहभागितवन्त

तक्कित यत् त्रि तलाक प्रकरणानि विवर्धितानि विध्यक्रीऽयं महिलाभ्य न्याय अधिकारश्च प्रदास्यति

अद्य नवदिल्ल्यां राज्यानां वित्तमन्त्रिभि साकम् आय व्यय पत्रक प्रस्त्तनात् प्राक् विचार विमर्शे तया लक्ष्यं प्रपूरवित् क्विपक्षत पूर्ण सहयोग आश्वासित

जावडेकर सूचना प्रसारण मन्त्रिणा प्रकाश जावडक्रिणभणितं यत् प्रशासनप्त प्रामक विज्ञापन प्रकरणानि अपाकर्त् संस्थागत व्यवस्था एका विरचिता